पथ्चिमबंगाल असमराज्ययो प्रथमचरणात्मकमतदानाय समेषामपि राजनैतिकदलनेतृणां जनसभा समायोज्यमाना सन्ति सर्वकारेण ऑनलाइन शिक्षकविद्यार्थीपंजीकरणप्रबन्धप्रणात्यां विद्यमानानि प्रमाणपत्राणि डिजीलॉकर इत्यनेन सह पंजीकरणशुल्कं विना योजनस्य घोषणा कृता प्रशासनेन पर्यटक यान संचालनाय एका नवीना योजना निर्मिता भारतेन अद्यावधि प्रयाश एकसप्ततिदेशभ्य षडाशीतिलक्षानि कोरोना प्रतिरोधि सूच्यौषधानि सम्प्रेषितानि भारते प्रायश त्रिकोटिजना कोरोनासूच्यौषधै लाभन्विता जाता भारतीय सेनया निश्चितं यत् उपयुक्त अभ्यर्थीनां चयनप्रक्रियाया कृत्सित आचरणसम्बद्ध प्रकरणं केन्द्रिय अन्वेषणविभागाय प्रदास्यति इति

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

असम पश्चिमबंगाल केरल तमिलनाड़ अथ केन्द्रशासितप्रदेश पदच्चेरी राज्येष् विधानसभानिर्वाचनस्य विभिन्ना गतिविधय प्रचलन्ति पश्चिमबंगाल असमराज्ययो प्रथमचरणात्मकमतदानाय समेषामपि राजनैतिकदलनेतृणां जनसभा समायोज्यमाना सन्ति अद्य बीजेपी इति दलस्य वरिष्ठ प्रमुख प्रचारिकया स्मृति ईरानी इत्याख्यया प्रथमचरणमतदान संबद्धक्षेष् नैका जनसभा सम्बोधिता अनया विपक्षिदलाय तृणमूलकांप्रेसाय बंगालप्रदेशस्य जनै सह वंचनस्य आरोप कृत पोखरियाल डिजीलॉकर केन्द्रीय शिक्षा मन्त्रिणा रमेशपोर्खरियाल निशंकेन ऑनलाइन शिक्षकविद्यार्थीपंजीकरणप्रबन्धप्रणाली ओटीपीआरएमएस इत्येतस्मिन् विद्यमानानि प्रमाणपत्राणि डिजीलॉकर इत्यनेन सह योजनस्य घोषणा कृता अनेन सत्यापित प्रमाणपत्राणां सुगमता सुनिश्चितं भविष्यति

एतस्यां योजनायां पर्यटका अखिल भारतीय पर्यटक प्राधिकरणेन स्वीकृतिं प्राप्य ऑनलाइनमाध्यमेन आवेदनं कर्त् शक्नुवन्ति तदनन्तरं आवश्यक प्रपत्रै श्ल्कैश्च साकं स्वीकृति प्रदास्यते यस्मात् राज्येष् पर्यटनसंख्याया वृद्धि भविष्यति इति अनुनियते संस्कृतवार्ताया संस्करणमिदं इदानीं आकाशवाणीत प्रसार्यते

एकसप्ततिदेशेष् सप्तत्रिशत् देशान् निश्ल्करूपेण एकाशीतिलक्ष सूच्यौषधानि प्रदत्तानि

भारतं सर्वतोभावेन कोविड महामार्या संघर्षे सहायतायै तत्परो वर्तते

ह्यो नवदशसहम्राधिक पंचदशलक्षाधिकै जनै कोरोना प्रतिरोधि सूच्यौषधं सम्प्राप्तम् स्वास्थ्य मन्त्रालयेन निष्पादितम् यत् देशे कोरोना महामार्याः स्वस्थताप्रतिशतता अध्ना षण्णवति दशमलव सप्त पंचमिता अंकिता विगतास् चतुर्विंशतिहोरास् सप्तत्रिंशदधिक षड्शतोत्तर षोडशसहस्रं जना स्वस्थीभूता

आर्मी सेलेक्शन भारतीय सेनया निश्चितं यत् उपय्क्त अभ्यर्थीनां चयनप्रक्रियाया कृत्सित आचरणसम्बद्धं प्रकरणं केन्द्रिय अन्वेषणविभागाय प्रदास्यति इति सैन्यबलेन सूचितं यत् ग़प्त अभिकरणमाध्यमेन कदाचारसम्बद्धप्रकरणमिदं समागतमासीत् यस्य अन्वेषणप्रक्रियायां नैकानि संस्थानि सम्मिलितानि सन्ति अत निष्पक्षतया प्रक्रियाया अन्वेषणाय केन्द्रिय अन्वेषणविभागाय प्रदत्तम्

कार्यक्रमोऽयं छात्रेभ्य चिन्तामुक्त वातावरणस्य निर्माणाय अस्ति यस्मिन् नेतृत्वरूपेण प्रधानमन्त्री भवति आकाशवाण्या वार्ताहर प्रावोचत् यत् अयं कार्यक्रम प्रतिवर्ष प्रचलति एतस्मिन् कार्यक्रमे न केवलं छात्रा भविष्यन्ति अपि त् अभिभावका अध्यापकाश्च उपस्थिता भविष्यन्ति

इयं प्रतिस्पर्धा नवमीकक्षात द्वादशकक्षापर्यन्तं छात्राणां कृते वर्तते प्रतिस्पर्धायां पुरस्कारस्वरूपेण एकं प्रशस्तिपत्रम् प्रदास्यते

अम्ना एतद्वक्तव्यं उत्तरप्रदेशस्य सोनभद्रजनपदे जनजातीय सभा सम्बद्धवनवासीनां समागमावसरे प्रतिपादितम् अत्रैव राष्ट्रपति एतदपि उक्तं यत् यथा भगवता श्रीरामेन वनवासीसम्दायस्य सहाय्येन विजय अधिगमत तथैव अद्य देशस्य विकासपथि नयनाय जनजातीसम्दायस्य विकास कर्तव्य राष्ट्रपति प्न अप्रे प्रावोचत् यत् जनजातीनां कृते कार्यरतानि शिक्षणसंस्थानानि देवतुल्यानि सन्ति एतेष् शिक्षणसंस्थानेष् छात्रा शिक्षाया प्रसाद प्राप्नुवन्ति ये कालान्तरे विभिन्नक्षेत्रेष् विकाससम्पादने कार्य कुर्वन्ति

राष्ट्रपतिना समारोहे सम्बोधयता प्राकृतिक सम्पदानां संरक्षणे भगवतः बिरसा मृण्डायाः बलिदानस्य महत्त्वमपि प्रबोधितम् अस्मिन् समारोहे राज्यस्य मुख्यमंत्री योगी आदित्यनाथ राज्यपाल आनंदी बेन पटेलादय राज्यस्य वरिष्ठाधिकारिण समपस्थिता आसन्

अपि च केरलविधानसभानिर्वाचनाय द्वादशोत्तरैकशतप्रत्याशीनां नामानि प्रकाशितानि सन्ति